फरवरीमासस्य अष्टम्यां भविष्यन्ति मतदानानि एकादशे च मतगणना सम्पूर्णतां नेष्यति प्रर्वतते अद्यप्रभृति आदर्शाचारसंहिता ग़हमन्त्रिणा अमितशाहेन दिल्ल्या उपराज्यपालम् आदिष्ट ं जवाहरलालनेहरूविश्वविद्यालयीय प्रतिनिधय विहिते हिंसाप्रसंगे वार्तायै कृषकाणामायद्विग्णीकरणे प्राधान्यम् उक्तं भारतीयकृष्यन्सन्धानमहानिदेशकेन दिल्लीविधानसभानिर्वाचनम् दिल्ल्या विधानसभानिर्वाचनं फरवरीमासस्य अष्टमे दिनांके भविता निर्वाचनायोगेन अद्य सायं सप्तत्यासनयुक्ताया विधानसभाया निर्वाचनतिथि घोषिता मुख्यनिर्वाचनायुक्तेन सुनील अरोड़ावर्येण उक्तं यत् राष्ट्रियराजधानीक्षेत्रे दिल्ल्यां स्वतन्त्रनिष्पक्षपारदर्शीनिर्वाचनाय नवतिसहस्रारक्षिभटा निय्क्ता सन्ति अग्रे तेनाक्तं यत् दिल्लीनिर्वाचनार्थं त्रयोदशसहस्रमतदानकेन्द्राणि स्थापयिष्यन्ते येष् दशमलवोत्तर षट्चत्वारिंशदेककोटिमतदातार मतदानं करिष्यन्ति जेएनयू हिंसा सूचनाप्रसारणमन्त्रिणा प्रकाशजावडेकरेण जवाहरलालनेहरूविश्वविद्यालये द्रापदिता हिंसाघटना कट्वालोचिता तेनोक्तं यत् प्रसङ्गस्य अस्य त्वरितान्वेक्षणं भवितव्यम् तेनारोपितं यत् कांग्रेस वामदल आम आदमी पार्टीति दलानि किञ्च अन्यतत्वानि देशस्य अस्य विश्वविद्यालये हिंसाया वातावरणं निर्मात् प्रयासरता जवाहरलालविश्वविद्यालयप्रशासनेन ह्य सायम् एव विश्वविद्यालयपरिसरे विहिते हिंसाया विस्तृतं विवरणं मानवसंसाधनविकासमन्त्रालयं प्रेषितम् विज्ञानकांग्रेस सम्मेलनम् बेंगलुरूनगरे आयोज्यमाणे विज्ञानकांग्रेस इति सम्मेलने भारतीयकृष्यन्सन्धानपरिषद महानिदेशकेन डॉ त्रिलोचकमहापात्रा इत्यनेन उक्तं यत् दवाविंशत्यधिकदविसहस्रतमे वर्ष कृषकाणामायस्य द्विग्णीकरणार्थ उत्पादनपोषणस्रक्षायां क्रान्तिकारं परिवर्तनं भविष्यति असौ कृषकविज्ञानकांग्रेस इति सम्मेलनस्य उद्घाटनान्तरं उक्तं यत् प्रधानमन्त्रिण आह्वानोपरान्ते जनसामान्यस्य दृष्टिकोणे परिवर्तनं जातम् तेनाग्रे उक्तं यत् प्रगतिशीलकृषकाणां नवाचारं प्रोत्साहयित् कृषक नवाचार कोष किञ्च नवाचारकेन्द्राणि स्थापयिष्येते

अनेन साकमेव उपराज्यपालस्य गिरीशचन्द्रमुर्म इत्यस्य त्रय परामर्शका भविष्यन्ति उपराज्यपालस्य अन्यौ दवौ परामर्शकौ केकेशर्माफारूक खानस्य च नियुक्ति नवम्बरचत्र्दश्यां जाता अमित शाह साइकिलवॉक ग़हमन्त्रिणा अमितशाहेन अदय राष्ट्रियराजधान्यांतुगलकाबादे अदय दिल्ली साइकिल वॉक इति परियोजनाया आधारशिला स्थापिता परियोजनाया उददेश्यं नगरमम् सर्वाधिकगमनयोग्यं पर्यावरणान्कूलञ्च निर्मात् वर्तते

गृहमन्त्रिणा अमितशाहेन भणितं यत् दविचक्रिकापथेन दिल्ल्या प्रद्षणं विंशति प्रतिशतात्मकम् अपचेष्यति तेन आम आदमी पार्टीति प्रशासनमारोपितं यत् तद्दलेन अष्टाशीतिप्रतिशत नैर्वाचनिकसंकल्पा नैव पूरिता केन्द्रीयमन्द्रिणा हरदीपसिंहप्रिणा अपि अरविन्दकेजरीवालनेतृत्वय्तं प्रशासनं आलोचितं यत् तद्दलेन केवलं विज्ञापनोपरि ध्यानकेन्द्रितं वर्तते